तन्न्यासं प्रति मन्दिर निर्माणार्थं विवादित भूमि समर्पयेदिति

शीर्षन्यायालय शीर्षन्यायालयेन केन्द्रप्रशासनं सन्दिष्ट यत् केन्द्र मासत्रयाभ्यन्तरे एव योजनानग्ण न्यास घटनं क्र्यात् अपि च तन्न्यासं प्रति अयोध्यायां मन्दिर निर्माणार्थं विवादित भूमिं समर्पयेदिति उच्चतमन्यायालय सुन्नी वक्फ बोर्ड इति मुस्लिमविशिष्ट संघटनाय वैकल्पत्वेन पञ्च प्रहल परिमित भूमिं प्रददात्मपि केन्द्रप्रशासनं समादिष्टवान् अयोध्याभूमि विवाद बाबरी मस्जिद विवाद प्रकरणमवलम्ब्य निर्णयश्रावणकाले शीर्षन्यायालयेन आदेशोऽयं प्रदत्त प्रकरणेऽस्मिन् सर्वेऽपि निर्णया षट् न्यायाधीशानां खण्डपीठेन सर्वसम्मत्या गृहीता प्रधानमन्त्री अयोध्या शीर्ष न्यायालयेन अयोध्या भूमि विवाद प्रकरणे श्रावित निर्णय प्रधानमन्त्रिणा इतिहासभूत सम्पवर्णित ट्वीट् सन्देशे श्रीनरेन्द्रमोदी लिखितवान् यत् न कैश्विदपि जय पराजय भावेन निर्णयोऽयं द्रष्टव्य अवसरेऽस्मिन् प्रधानमन्त्रिणा शान्ति सौहार्द भावस्थापनार्थं देशवासिनो अध्यर्थिता द्वयो पक्षयो यथासमयं यथोचितञ्च तर्कवादश्रवणानंतरं शीर्षन्यायालयेन चिरप्रतीक्षितस्य एतस्य महत्त्वाधायि विवादास्पद प्रकरणस्य न्यायपरं समाधानं विहितमं भविष्ये न्यायालयीय प्रक्रियायां जनानां विश्वासभावोपपादने निर्णयोऽयं सहायक सेत्स्यति गृहमन्त्रिणं रक्षामन्त्रिणं अत्पसंख्यकमन्त्रिणं च समेत्य अनेकै केन्द्रीयमन्त्रिभि धर्मगुरूभि विद्वन्द्रि राजनेतृभि नाना संप्रदाय संघटन प्रमुखैश्व शीर्षन्यायालयेन श्रावित महात्त्वाधायि निर्णयोयं स्वागतीकृत अत्रान्तरे काचिदपि द्र्घटनापवारणं निध्याय उत्तस्प्रदेशे दृढ स्रक्षा प्रबन्धा प्रकल्पिता सन्ति

दिव्यज्ञानस्य प्राप्तिम् चालभत् एतस्मादेव पुण्य स्थलात् मानवता सौहार्द सान्निभा आजीवनं पालनीया सन्देशा अपि अमुना प्रसारिता बेरसाहिब दर्शनानन्तरं प्रधानमन्त्री गुरूदासपुरे नवनिर्मितस्या करतारपुर वीथ्या एकीकृत स्थात्रस्य चोद्घाटनम् अकरोत् अनन्तरं डेरा बाबा नानके श्रद्धाल सभोद्रोधनकाले श्रीनरेन्द्रमोदी न्यगादीत यत् करतारपूर वीथ्या एकीकतान्वीक्षण स्थात्रस्य चोद्घाटनेन द्विग्णीभूता प्रसन्नता सम्प्रति पाकिस्ताने स्थिते दरबार साहिब ग्रूद्वारे श्रद्वालूना गमनागमनं सारल्येन भविष्यति भारतस्य श्रद्धासम्वलिता भावनैषा अधिगन्त् प्रधानमन्त्रिणा पाकिस्तानीय समकक्षाय इमानखान इत्यस्मै धन्ववादा प्रदत्ता सुचनाप्रसारण मन्त्रालय प्रशासनेन सन्दिष्ट यत् अयोध्या भूमि विवाद प्रकरणे शीर्षन्यायालये श्रावित निर्णयमाधृत्य प्रसार्यमाणे कंथकारकेऽपि संवादे कार्यक्रम नियमानपालनम आवश्यकमस्ति सब्चेतनेयं सुचना प्रसारणमन्त्रालयेन प्रख्यापिता सब्चेतनानगणं धर्माघात भावयुत संवाद देश विरूद्ध व्यवहारोद्दीपन कारिका परिचर्चा देशस्य सन्द्रावोन्मूलनात्मकं च प्रबोधनं क्त्रचिदपि न कथमपि सहिष्यते इति